राष्ट्रपतिना रामनाथ कोविदेन प्रोक्त यत् न्यायिकप्रणाल्या उद्देश्य न केवल विवादानी शमन वर्तते अपित न्यायस्य संरक्षणमपि अस्ति सर्वकारेण स्वतन्त्रताया पंचसप्ततितमाया जयन्त्योत्सवाय प्रधानमन्त्रिण नरेन्द्रमोदिन आध्यक्ष्ये समिति गठिता तमिलनाडुराज्ये सत्तारूढेन अखिल भारतीय अन्ना ट्रमुक मनेत्र कड़गम इति दलेन भाजपा इति दलाय विशति आसनानि आवण्टितानि सहक्विकन्याकुमार्या संसदीयक्षेत्रमपि भाजपा इति दलाय प्रदत्तम् देशे अद्यावधि चत्र्णवतिलक्षाधिकक्किकोटिजनेभ्य कोरोनासुरक्षाया सूच्यौषधानि प्रदत्तानि चतुश्रूखलात्मकस्य क्रिकेट निकषस्पर्धायां भारतेन इंग्लष्डिदेशं मानमर्दनसहितम् एकस्योत्तरे स्पर्धात्रयं जयन् श्रृंखला विजिता

अथ वार्ता विस्तरेण कमांडर सम्मेलनम् अद्य प्रधानमंत्री नरेन्द्रमोदी केवडियाक्षेत्रे संयुक्तकमाण्डर सम्मेलनाख्यस्य सैन्याधिकारीणी सम्मेलनस्य समापनसत्रम् सम्बोधितवान् अस्मत्वार्ताहर न्यगादीत् यत् अद्य प्रातरेव श्रीमोदी केवड़ियानगरं सम्प्राप्त तत्र राज्यपाल आचार्य देवव्रतेन साकं मुख्यमंत्रिणा रूपाणीवर्येण च अधिकारिभि सह प्रधानमन्त्रिण स्वागतं कृतम्

अस्य त्रिदिवसीयस्य संयुक्त सैन्य नियन्त्रणाधिकारीणां सम्मेलनस्य आयोजनं वर्षत्रयानन्तरं जातम् सम्मेलनस्यास्य तृतीये दिबसे अद्य प्रधानमन्त्रिण आध्यक्षे निष्पादिते कार्यक्रमे राष्ट्रियसुरक्षापरामर्शद अजितडोभाल रक्षासेनाप्रमुख विपिनरावत थलसेनाप्रमुख मनोज मुकुन्द नरवणेवर्य वायुसेनाप्रमुख राकेशकुमारसिंहभदौरियावर्य जलसेनाध्यक्ष एडमिरल करमबीरसिंहश्च सहभागिताम् अकुर्वन् ध्यातव्यमस्ति यत् केवड़िया इति क्षेत्र ग्जरात प्रदेशे अस्ति यत्र हि एकताया मूर्तिरपि विराजते सरदारवल्लभभाईपटेलवर्यस्य राष्ट्रपति न्यायप्रणाली राष्ट्रपतिना श्रीरामनाथ कोविन्देन प्रोक्त यत् न्याय प्रणाल्या उद्देश्य न केवल विवादानी शमने अस्ति अपित् न्यायिकव्यवस्थाया अक्षण्णरूपेण संरक्षणमपि वर्तते अमुना अद्य मध्यप्रदेशस्य जवलपुरनगरे अखिलभारतीय न्यायिक अकादम्या निदेशकानां समारोहे सम्बोधयता एतदपि उक्तं यत् न्यायप्रक्रियायां जायमानस्य बिलम्बस्य समाप्ति एतस्या संरक्षणदिशि महत्वपूर्ण पदक्षेपो वर्तते अत्रैव राष्ट्रपति न्यगादीत् यत न्यायिकव्यवस्थायां परिष्कारार्थं सम्बद्ध अधिकारिभ्य प्रशिक्षणं प्रदातव्यम् अपि च उत्तमनवाचारस्य प्रक्रिया राष्ट्रिय अन्ताराष्ट्रियस्तरे च भवेत् सहैव न्यायिकव्यवस्थायां तकनीकीनां उपयोगस्याऽपि अम्ना प्रशंसा कृता अत्रावसरे पुन उदीरित यत् देशे अष्टादशसहम्राधिका न्यायालया पूर्णत संगणकाधारितव्यवस्थायुता वर्तन्ते इति सावसरे राष्ट्रपतिना संसूचितं यत् कोरोना महामार्याः पूर्णपिधानावसरेऽपि षष्टि उत्तर सप्तकोटिमितानां न्यायिकप्रकरणानी निस्तारणम् आभासीयोपवेशनमाध्यमेन विहितम् अवधेयमस्ति यत् अस्मिन् समारोहे भारतस्य प्रधानन्यायाधीश शरद अरविंद बोबडेवर्य मध्यप्रदेशस्य राज्यपाल महोदया आनन्दीबेन पटेल मुख्यमन्त्री शिवराज सिंह चौहान इत्यादय समुपस्थिता आसन्

समितौ एकोनषष्ट्यधिकपंचशत सदस्या सन्ति यस्या समाजस्य सर्वेभ्य वर्गेभ्य सुविख्यातजना सन्ति एषा समिति राष्ट्रिय अन्ताराष्ट्रियस्तरे च स्वतन्त्रताया पंचसप्ततितम जयन्ते नैकाना कार्यक्रमाणा सन्नद्वता सम्बद्ध नीतिगतदिशानिर्देशा प्रदास्यति आगामि ख़िष्टाब्दस्य अगस्तमासस्य पंचदशदिनांकत स्वतन्त्राया पंचसप्ततितमस्य जयन्ते पंचसप्ततिसप्ताहप्रागेव उत्सवात्मकानां कार्यक्रमाणां शुभारम्भो विधास्यते आगामी द्वादशमार्चत एते कार्यक्रमा समारब्धा भविष्यन्ति

समिते प्रथमोपवेशनम् परश्व सोमवासरे भविता

प्रशासनम् राष्ट्रियान्ताराष्टियस्तरेष् कार्यक्रममिमं स्वतन्त्रताया अमृतमहोत्सव रूपेण आयोजनाय समुत्सुकं वर्तते संस्कृतवार्ताया संस्करणमिदं इदादीम आकाशवाणीत प्रसार्यते

यद्धि कांग्रेससांसद वसन्तकुमारस्य मृत्यो पर रिक्तम् आसीत्

कोविड अपडेट देशे अद्यावधि चतुर्णवतिलक्षाधिकैककोटिजनेभ्य कोरोनासुरक्षाया सूच्यौषधानि प्रदल्तानि स्वास्थमन्त्रालयेन सेसूचित यत् विगते अहोरात्रे एव पंचदश लक्षप्रायः जनेभ्यः इद प्रदत्तम् एतदन्तराले कोविडमहामार्या स्वस्थतामाने अष्ट नव दशमलवोत्तर षण्णवतिप्रतिशतम् अंकितम् ध्यातव्यमस्ति यत् साम्प्रतं यावत् अष्टलक्षाधिक एककोटिजना रोगादस्मात् स्वस्था अभूवन् सम्प्रति उपचाररतानी सक्रियप्रकरणानी सैख्या अशीतिसहम्राधिक एकलक्षाधिका वर्तते स्वास्थ्य उपवेशनम् केन्द्रीयस्वास्थ्यमन्त्रालयेन राज्यानां केन्द्रशासितप्रदेशानां च कोविडमहामार्या स्थितिविषये नीति आयोगेन सह मितित्वा समीक्षा कृता यत्र राज्येष् महामार्या सक्रियप्रकरणानां न्यूनताविषयिकी चर्चा विहिता सेन्टर टीम केन्द्रसर्वकारेण उच्चस्तरीय बहु अनुशासनात्मक सार्वजनिकस्वास्थदल कोरोनाप्रकरणानी तीव्रताकारणात् पंजाबमहाराष्ट्र राज्यं प्रति प्रेषितम्

प्रधानमंत्री सार्थसप्तसहस्रतमं जनौषधिकेन्मपि लोकार्पयिष्यति अस्या योजनाया कार्यान्वयने निरतेभ्य कतिपयेभ्यश्च कार्यकर्तृभ्य श्रीमोदी परस्कारमपि प्रदास्यतीति अस्मत्वार्ताहर न्यागादीत्